स्वस्थताया प्रतिशतता संवर्ध्य षण्णवति दशमलव अष्ट त्रिमिता अंकिता

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपाद च यथासमयं प्रक्षालयन्त राष्ट्रपति रामनाथ राष्ट्रपति रामनाथ कोविंदेन प्रोक्त यत् मताधिकारः सामान्याधिकार नास्ति राष्ट्रपतिना देशवासिनः अस्याधिकारस्य सम्मानं कर्तं आवाहिताः राष्ट्रिय मतदातु दिवसोपलक्ष्ये अद्य नवदिल्ल्याम् एकं कार्यक्रमं दूश्यश्रव्यप्रणाल्या संबोधयता श्रीमत्कोविन्देन अवादि यत् सामान्येन जनाः तेषाम् उपलब्धीनाम् अवधानं न रक्षन्ति ये सारल्येन प्राप्यन्ते राष्ट्रपतिः प्रावोचत् यत् अयमधिकारः जनेभ्यः धर्म जाति सम्प्रदायादिभेदभावैः विना संप्राप्तोस्ति

तेनोक्त् कोविड् महामार्या कालेऽपि जम्मूकश्मीरे लद्दाखे च निर्वाचनानां साफल्येन सब्चालनं भारतीय लोकतन्त्रस्य श्रेष्ठमुदाहरणमस्ति गतेष् पब्चसप्ततिवर्षेष् भारतम्आविश्वे आदर्शलोकतन्त्रदेशत्वेन उदितम् अस्ति अवधेयमस्ति यत् राष्ट्रिय मतदातू दिवस अद्य आभारते नवमतदातृन जागरितुं मान्यते अयं दिवस प्रतिवर्ष ं एकादशोत्तर द्विसहस्रतमात् वर्षात् परिपाल्यते

अद्य दृश्य श्रव्य परान्तर्जालीय माध्यमेन प्रधानमन्त्री राष्ट्रिय बाल प्रस्कार विजेतृभि समं व्यवहरता प्रधानमन्त्री अवोचत् यत् कोविड महामार्या कालेपि भवन्द्रि स्वप्रतिभाया बलेन अयम् प्रस्कार सम्प्राप्त

प्रशासनं प्रधानमन्त्री राष्ट्रिय बाल पुरस्कारान्तर्गत बाल शक्ति पुरस्कारान् तेभ्यो बालेभ्य प्रददाति ये हि असाधारणयोग्यता नवाचारं विद्वतोपलब्धि क्रीडा कला संस्कृतिक सामाजिक क्षेत्रीयां अभूतपूर्व योग्यतां सम्पादयन्ति एत्त् वर्षेभ्यो द्वात्रिंशत् बाला एतत्पुरस्काराय चिता

राष्ट्रपते सम्बोधनं सायं सप्तवादने आकाशवाण्या दरदर्शनस्य च सर्वाभि वाहिभि प्रसारयिष्यते दरदर्शने प्रसार्यमाणं इदं सम्बोधनं हिन्दीभाषया सहैव आङ्गल टिप्पण संवलितं भविष्यति आकाशवाणी क्षेत्रीय भाषायां इदं सम्बोधनं रात्रौ सार्धं नव वादने प्रसारयिष्यति इति

अस्य कार्यक्रमस्य उद्देश्य नवीन मतदातृभ्य मतदाता सूच्यां प्रवेशाय प्रोत्साहनं सुविधा प्रदानम् च वर्तते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 राष्ट्रपति श्रीरामनाथकोविन्द अवसरेऽस्मिन नवदेह्ल्यां आयोज्यमाणस्य कार्यक्रमस्य मुख्यातिथि आसीत

दिवसेऽस्मिन् कोविड नवदश महामार्यां मतदानं सुचारुरूपेण आयोजनाय निर्वाचन आयोगस्य प्रतिबद्धतायामपि प्रकाश पातनम् आसीत् अवसरेऽस्मिन् राष्ट्रपतिना राष्ट्रिय प्रस्कारमपि प्रदत्तं सहैव निर्वाचनायोगस्य वक्व रडियो हैलो वोटर्स इत्यस्य कार्यक्रमस्यापि शुभारम्भो विहित

स्वास्थ्यमन्त्रालयेन निगदितं यत् विगते अहोरात्रे भ्योऽपि त्रयस्त्रिंशत्मिता जना सच्यौषध प्रदानेन लाभान्विता जाता अपि च कोविड रोगिणां स्वस्थताया प्रतिशतता संवध्य षण्णवति दशमलव अष्ट त्रिमिता अंकिता विगतास् चतुर्विंशतिहोरासु अस्मात संक्रमणात् प्राय त्रयोदशसहस्रं रोगिण स्वस्थीभृता तत्रैव संक्रमितानां संख्या द्वयशीत्योतरशताधिक चत्रशीतिसहस्रोतर लक्षमिता सञ्जाता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 भारत पर्व वार्षिकोत्सव भारतपर्व इति अस्मिन् वर्षे श्व प्रारभ्य एकत्रिंशत् तारिकां पर्यन्तं दृश्यश्रव्य परान्तर्जालीय माध्यमेन पारिपालयिष्यते

शौर्यपुरस्कार गणतन्त्र दिवसोपलक्ष्ये षड्चत्वारिंशदृत्तर नवशतेभ्य प्लिसकर्मिभ्य पदकानि प्रदत्तानि सन्ति एतेष् सप्तोतर द्विशतेभ्य शौर्यपुरस्कारा तथा च नवत्रिंशद्त्तर सप्तशतेभ्य सेवा पुरस्कारा च प्रदत्ता सन्ति

इयं वार्ता भारतीय सेनाया चीनसैन्यस्य च मध्ये मोल्डोबीपीओ इत्याख्ये स्थाने ह्य प्रात प्रारब्धा तथा च सप्तदशहोरानन्तरं समाप्तिं गता भारतपक्षत लेफ्टिनेंट मेनन आध्यक्ष्यम् अभजत् तेनोक्त यत् इद चीनदेशस्य उत्तरदायित्वं यत् सीमाक्षेत्रेष् शान्तिपूर्णरीत्या अप्रैलमासवत् स्थिति प्नरवस्थिता भवेत् गणतन्त्र दिवस राष्ट्रम् श्व द्विसप्ततितमं गणतन्त्र दिवसं परिपालयिष्यति अस्य मुख्य कार्यक्रम राजपथे दिल्याम् आयोजयिष्यते अस्मिन् वर्षे कोविड महामारीकारणात् समारोह अयम् भिन्न भविष्यति इति वार्ता